अनन्तरं देशद्वयस्य प्रधानमन्त्रिभ्याम् थिम्पूनगरे विंशत्यधिक सप्तशतं मेगावॉट युतं मंगदेचृ जलविद्युत संयन्त्रम् उदघाटितम् बिहारस्य भोजप्रस्थेन जनपदस्य न्यायालयेन विगतदिने पञ्चदशोत्तरद्विसहस्रतमेवर्ष आरा न्यायालये द्रापादिते विस्फोट प्रकरणे अष्टौ जना दोषिणा प्रतिपादिता ऋत्विज्ञानविभागेन हिमाचलप्रदेशस्य पर्वतीय क्षेत्रेष् अद्य प्रबलवृष्टि सञ्चेतितास्ति प्रधानमंत्री भुटान प्रधानमंत्री नरेन्द्रमोदी दविदिवसीय भूटान यात्रायै गतदिने भूटानं सम्प्राप्त श्रीमोदिना भ्टानस्य प्रधानमन्त्रिणा लोते त्शेरिंग वर्येण सह सम्भाषणं कृतम् नेतृदवयेन पारस्परिक सम्बन्धानां समीक्षा कृता सम्बन्धानां दृढीकरणाय च विचारविमर्शो विहित अत्रावसरे भारत भूटानयो मध्ये दश सन्धय हस्ताक्षरितानि अनन्तरं देशद्वयस्य प्रधानमन्त्रिभ्याम् थिम्पूनगरे विंशत्यधिक सप्तशतं मेगावॉट युतं मंगदेचू जलविद्युत संयन्त्रम् उद्घाटितम् सममेव भारत भूटानयो जलविद्य्त क्षेत्रे पञ्चाशत् वर्षपूर्तो स्मारक चिटिका अपि प्रख्यपिता एशिया माहद्वीपीय उपग्रहेभ्यो भ्केन्द्रोद्घाटनपट्टिका अपि अनावता प्रधानमंत्री श्रीमोदी भूटाननरेशम् जिग्मेखेसर नाम्ग्यालम् अपि अमिलत् बिहार बिहारस्य भोजप्रस्थेन जनपदस्य न्यायालयेन विगतदिने पञ्चदशोत्तरद्विसहस्रतमेवर्षे आरा न्यायालये द्रापादिते विस्फोट प्रकरणे अष्टौ जना दोषिणा प्रतिपादिता न्यायालयेन साक्ष्याभावे पूर्व विधायक स्नेल पाण्डेयम् समेत्य जनत्रयं विमोचितम् दोषिभ्य दण्ड निर्धारणाय वादश्रवणाय च मंगलवासरीयो दिवस निर्धारित हिमाचल ऋत्विज्ञानविभागेन हिमाचलप्रदेशस्य पर्वतीय क्षेत्रेष् अदय प्रबलवृष्टि सञ्चेतितास्ति शिमला सोलन मण्डी कांगड़ा जनपदेष् स्थलेदवये सविशेषं संचेतना प्रसारिता वर्तते राज्यप्रमुखा नद्य जलपूर्णा वर्तन्ते

जनपदप्रशासनेन संचेतना प्रसारितास्ति गतरात्रौ संजातेन भूस्खलनेन चम्बा जनपदे चम्बा पठानकोट राष्ट्रिय राजमार्ग मण्डी जनपदे च चण्डीगढ़ मनाली राष्ट्रियराजमार्ग अवरूदधौ स्तः पोखरियाल मानव संसाधन विकासमंत्री रमेश पोखरियाल निशक गतदिने नवदिल्ल्यां अध्यापकानां शिक्षया सह संबद्ध अन्ताराष्ट्रीय सम्मेलनस्य उद्घाटनं अकरोत्

तेन प्रोक्तम् यत् विगत सहस्र वर्षत भारतीय अध्यापका विश्व ग्रूव उच्यन्ते कुर्णाटक कर्णाटकस्य मुख्यमंत्री बी एस येदियुरप्पा प्रावोचत् यत् आगामिने मंगलवासरे तस्य मन्त्रिमण्डले विस्तारो विधास्यते एकस्मिन् ट्वीट सन्देशे तेन लिखितं यत् मंगलवासरे भाजपादलस्य विधायकानां उपवेशनं भविष्यति